महाराष्ट्र ठाकरबिहमतम् महाराष्ट्रे उद्घवठाकरे इत्यस्य नेतृत्वे शिवसेना राष्ट्रवादी कांप्रेस पार्टी कांप्रेस पार्टीति दलत्रयस्य संयते महाविकास अघाडी प्रशासनेन अद्य समाहूते विधानसभाया द्वि दिवसीय विशिष्ट सत्रे शक्ति परीक्षणावसरे बहुमतं साधितम् द्वि वादने प्रारब्धे सदन कार्यान्वयने विपक्षिणां भूरि कोलाहलाचरणे भाजपादलस्य तद्वटकदलानां च बहिष्कृते सत्यपि उद्वव प्रशासनेन सदने बहमतं साधितम् सदने ऊनसप्तच्युत्तर एक शत संख्याकै विधायक उद्धवस्य पक्षे मतदानमाचरितम् तत्रविरोधे शून्यमेव मतं पतितम् अथ च मतचतुष्टयं तटस्थमेव अजायत एत वितुर्भि न कस्यापि समर्थने मतदानं कृतम् इत्थम् उद्धवठाकरे प्रशासनेन बहुमतसिद्धि समवाप्ता

त्रयोदशविधानसभासानेष् परिव्याप्ता छतरा पलामू ग्मला लातेहर लोहारदगा इति षड्जनपदानि प्रथमचरणान्तर्गते सन्ति समाहितानि

राष्ट्रपति कर्णपुरम् राष्ट्रपति श्रीमरानाथकोविन्द अद्य प्रावोचत् यत् प्रधानमन्त्रिणा विनिश्चिताया पञ्च ट्रिलियन डॉलर मूल्यात्मिकाया अर्थव्यवस्थाया लक्ष्य समर्जने प्रविधि महत्वपूर्णां भूमिकां निर्वहति

इमे विधय पूर्वस्मिन् जम्मूकश्मीर राज्ये क्रियान्विता नासन्

प्रस्कारोऽयं नवरचनात्मक उत्पादानां उत्पादकेभ्य सम्प्रदास्यते वाणिज्योद्योग मन्त्री पीयृषगोयल प्रावोचतु यतु पुरस्कार विजेतुणां चयनं धनार्जनस्य आधिक्यदुशा एव न अपितु सामाजिक योगदानदुशापि करिष्यते

रक्षामन्त्री राजनाथसिंह रक्षामन्त्रिणा श्रीराजनाथसिंहेन प्रोक्तं यत् भारतं विरूध्य पाकिस्तानेन प्रचालितस्य आतंकवादरूपस्य छद्ययुद्धस्य प्रयासा न कदापि सफलिता भविष्यन्ति

आगामिनो डिसेम्बर मासस्य षष्ठो दिनांकः आवेदन प्रेषणाय अन्तिमा तिथिर्विद्यते इच्छ्काः अभ्यर्थिनः विज्ञप्रेः विस्तृत विवरणं डब्ल्यू डब्ल्यू डब्ल्यू डॉट् न्यूज् ऑन् एआईआर् डॉट् कॉम् इति अन्तर्जाल स्थानके द्रष्टमर्हन्ति

द्वितीये सप्ताहे कार्यसम्पादनं प्रतिशतं चतुरशीति मितं अवर्तत यस्मिन् महाराष्ट्र प्रशासन विरचन सम्बद्धा प्रसंगाश्चापि समाहिता वर्तन्ते